दिल्ली हिंसा घटनामधिकृत्य विपक्षिसदस्यै आचरित कोलाहल कारणात् अद्यापि स्थगितानि द्वयो सदनयो कार्यजातानि

कोरोना कोरोना विषाणु संक्रमण संकटम् आलक्ष्य प्रशासनेन सुनिश्चितम् यत् सम्प्रति देशस्य सर्वेष् विमानपत्तनेष् विदेशेभ्य समागतानां यात्रिणां चिकित्सकीयं परीक्षणं विधास्यते अदय नवदिल्ल्यां समनृष्ठितं उच्चस्तरीयोपवेशनानन्तरं सुचनामिमां प्रख्यापयत् स्वास्थ्यमन्त्री डॉ हर्षवर्धन अम्नोदीरितं यत् दिल्ल्या सर्वेडपि चिकित्सालया संक्रमणेन द्वष्प्रभावितेभ्य चिकित्सकीयं सौविध्यं उपपादयित् पृथक् व्यवस्था विधेयार्थ निर्दिष्टा सन्ति ध्येयमस्ति यत् अध्नावधि देशे अष्टाविंशति कोरोना संक्रमण प्रकरणानि प्ष्टिकृतानि प्रशासनेन प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी व्याहरत् यत् कोरोना विषाणु संक्रमण प्रसारं अवरोद्ध् बहदायोजनानि नैव विधातृं जगत प्रख्यातै विशेषज्ञै परामृष्टा जना तै एवं भूतानि सर्वविधानि कर्माणि स्थगितुं परामृष्टा यत्र बृहत्संख्यायां जना एकत्रीभूत्वा आयोजनं क्र्वन्ति ट्वीट् सन्देश माध्यमेन श्रीमोदिना कथितं यत् विशेषज्ञानां परामर्शम् अन्पालयन् संक्रमणं यथाशीघं निरोद्धुं च अहमपि ऐषम होली मिलन समारोहे नैव उपस्थास्यामि सदनम् दिल्ली हिंसा घटनामधिकृत्य विपक्षिसदस्यै आचरित कोलाहल कारणात् अद्यापि स्थगितानि द्वयो सदनयो कार्यजातानि विपक्षिसदस्या प्रथमं उक्तघटनायां परिचर्चार्थं अभियाचनां क्र्वन्त सन्ति यद्यपि प्रशासनं होली पर्वानन्तरं एकादशे दिनांके विषये परिचर्चा समीहते मन्त्रिमण्डलम् नागर विमानन क्षेत्रे मन्त्रिमण्डलेनाद्य एफडीआई इति वैदेशिक प्रत्यक्ष निवेश नीति अन्मोदिता एतद्विषयणी सूचना सूचना प्रसारण मन्त्रिणा प्रकाश जावड़ेकरेण प्रख्यापिता संशोधितेन वैदेशिक प्रत्यक्ष निवेश नीत्याधारेण एयर इण्डिया विमानानां क्रयणे वैदेशिका साम्प्रतं निवेशं कर्त् प्रभविष्यन्ति नागरिक उड्डयन मन्त्रालयेन विज्ञापितं यत् एयर इण्डिया विमानानि वैदेशिकेभ्य विक्रयार्थ साम्प्रतं शत प्रतिशत मितानि उपलब्धानि सन्ति इत पूर्व प्रतिशतं नवचत्वारिंशत् मितानि विमानानि एव वैदेशिक केतृभ्य आसन् उपलब्धानि राष्ट्रपति राष्ट्रपतिना रामनाथकोविन्देन पवन ग्प्तस्य दया याचिका निरस्ता

प्रकरणे संलिप्तेभ्य चत्भ्यों पि दोषिभ्य पटियाला हाउस न्यायालयेन मृत्युदण्ड श्रावित आसीत् ध्येयमस्ति यत् सन्दर्भेडस्मिन् मृत्युदण्डेन दण्डितानां त्रयाणां दोषिणां दया याचिका राष्ट्रपतिना प्रागेव निरस्ता आसीत् ललित कलाकादमी पुरस्काराः राष्ट्रपति भवने अद्य राष्ट्रपतिना रामनाथ कोविन्देन ललित कलाकादम्याः एकषष्टितमे वार्षिक पुरस्कार वितरण समारोहे पञ्चदश कलाकाराः सम्मानिता अत्र कलाविभागीयमन्त्री प्रहलाद सिंह पटेलः अपि उपस्थितो आसीत्